जम्मू कश्मीर ऐदम्प्राथम्येन वर्षेडस्मिन् एप्रिल् मासे समायोजयिष्यमाणाय वैश्विक निवेशक सम्मेलनाय सज्जा जवीयस्या गत्या प्रवर्तन्ते

केन्द्रीय गृहमन्त्रिण अमित शाहस्य असम मुख्यमन्त्रिण सर्वानन्द सोनोवालस्य च समक्षं त्रिपाक्षिकं सन्धिपत्रं हस्ताक्षरितम्

शीर्षन्यायालयनिर्भया निर्भया द्ष्कृति हत्या प्रकरणे दोषित्वेन सिद्ध मुकेश कुमार सिंह राष्ट्रपतिना निरस्तीकृतां तदीयां दया याचिकां विरुध्य अद्य सर्वोच्च न्यायालये याचिकामेकां प्रस्तुतवान् दोषिण मुकेश कुमारस्य दया याचिका राष्ट्रपतिना रामनाथ कोविन्देन जनवरी मासस्य सप्तदशे दिनाङ्के सर्वथा निरस्तीकृतासीत्